इतः पूर्वं एतस्मिन् वर्गे केवलं गभीरव्याधिप्रपीडितेभ्य जनेभ्य सूच्यौषधाभियानं समारब्धं आसीत् असम पश्चिम बंगालयो विधानसभा निर्वाचनयो द्वितीय चरणात्मकं मतदानं अद्य भविष्यति कोविड उनविंशति महामारी कारणेन समुपस्थितासु परिस्थितिषु अपि भारतीय रेलयान विभागेन अस्मिन् वित वर्षे अभूतपूर्व आयवृद्धि समर्जिता केन्द्रप्रशासनेन आर बी आई इति केन्द्रीय वित्त कोषाय आगामि पंचवर्षपर्यन्तं द्विप्रतिशत् वृद्धि पूर्वकं समेकितवृद्धिसमर्जनं चतु प्रतिशत्वेन समर्जनाय संसूचितम् रेफाल इति योद्धविमानस्य चतुर्थचक्रम् गतदिवसे ग्जरातस्य जामनगर विमानपत्तनं प्राप्नोत्

भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सड्कल्पं स्वीकुर्वन्तु मुख आवरकं सन्धारयन्तु सामाजिक द्रतां पालयन्तु पाणि पादं च यथा समयं प्रक्षालयन्तु

अद्य प्रभृति पंचचत्वारिशदधिकवयोवर्गीयेभ्य सर्वेभ्य जनेभ्य कोरोना प्रतिरोधि सुच्यौषधाभियानं प्रारभ्यते इतः पूर्वं एतस्मिन वर्गे केवलं गभीरव्याधिप्रपीडितेभ्य जनेभ्य सच्यौषधाभियानं समारब्धं आसीत् अस्माकं वार्ताहरानुसारेण एते पात्रजना अंतर्जालीयमाध्यमेन पात्रतापत्रकाणां पूरणाय समक्षा भविष्यन्ति जना कोविन इति अंतर्जातीयपटलमाध्यमेन पत्रकप्रपूरणं कत्त् शक्न्वन्ति नीत्यायोगस्य अध्यक्षेण राष्ट्रिय कोविड उनविंशति प्रम्खेण डा वीके पोलेन सर्वे पंचचत्वारिंशदधिकवयो वर्गीया जना सूच्योषद्यप्रहणाय समाहता सन्ता केन्द्रप्रशासनेन सूच्योषधाभियानस्य सम्यक् प्रचालनाय सवें दिड़निर्देशा प्रसारिता सन्ति एवंच अस्मिन् एवक्रमे केन्द्रीय स्वास्थ्य सचिवेन राजेश भूषणेन सवैं राज्यै केन्द्रशासितप्रदेशैश्च साकं पुनवीक्षण मंत्रणा अपि विहिता एवंच प्रत्येकस्मिन जनपदे सम्यक सुच्यौषधाभियानस्य संचालनाय दिङनिर्देशा अपि सम्प्रेषिता

एतदर्थं मतदानाय सर्वा आवश्यकसज्जा पुरितवन्त निर्वाचनायोगानुसरेण निर्वाचनप्रक्रियाया पारदर्शितां विश्वसनीयतां च सुनिश्चेतं सर्वेष् मतदानकेन्द्रेष् मतदान पृष्टि चीटिकाया अपि व्यवस्था सुनिश्चिता कोविड उनविंशति महामार्या निर्वाचनायोग मतदानकेन्द्रेष् एकसहस्त्रं मतदातृणाम् आगामनाय अनुमतिं प्रदत्तवान्

अस्य वित्तवर्षस्य समाप्तौ भारतीय रेलयान विभागेन चतुविंशत्यृत्तर द्वादशशत मिलियन टन मितत्मिका संवृद्धि समार्जिता या च विगते वर्षे पंचोतरद्वादशशत मितात्मिका एव आसीत् इत्थंच रेलविभागेन गतवर्षापेक्षया अस्मिन् वर्षे चतुस्तिंशदृत्तर षट्शतकोटिरूप्यात्मक मितात्मिका राशि समधिगता या च पूर्ववित्वर्षापेक्षया त्रिप्रतिशतम् अधिकत्वेन संसूचितम् आरबीआई केन्द्रप्रशासनेन आर बी आई इति केन्द्रीय वित्त कोषाय आगामि पंचवर्षपर्यन्तं द्विप्रतिशत् वृद्धि पूर्वकं समेकितवृद्धिसमर्जनं चत्ः प्रतिशत्वेन समर्जनाय संसूचितम् मूल्यवृद्धिनिरीक्षणाय केन्द्रप्रशासनेन पंचवर्षपूर्व केन्द्रीयवित्तकोषाय सममेव संसूचना प्रदत्तसीत्